एतल्लोकसभासनद्वयं वर्तते बिहारस्य समस्तीपुरं महाराष्ट्रस्य सतारा संसदीय क्षेत्रं च महाराष्ट्र विधानसभाया अष्टाशीत्यधिक द्विशतासनानां अथ च हरियाणाविधानसभाया नवत्यासनानां च कृते मतदान सोमवासरे अनुष्ठितमासीत् सहैव एकप चाशत् विधानसभासनेभ्य लोकसभासन द्वयाय उपनिर्वाचनमपि तस्मिन्नेव दिने सम्पादितमासीत् महाराष्ट्रे निर्वाचनायोगेन मतगणना कार्याथं पञ्चविंशति सहम्रधिका कार्मिका नियोजिता सन्ति मतगणना प्रात अष्टवादनात् सुदृढ़ सुरक्षा मध्ये समारप्स्यते आवश्यकोद्वोषणा आकाशवाण्या वार्तासेवाप्रभागेण हरियाणा महाराष्ट्र विधानसभा निर्वाचनानां परिणामविषये प्रवर्तमान वर्षीयो जनादेश कार्यक्रम क्रमशो हिन्द्यांग्ल भाषयो साक्षात् प्रसारयिष्यते कार्यक्रमोऽयम् एफएम् गोल्ड समेतासु सकलासु अतिरिक्त प्रसारणावृत्तिषु श्रोतु शक्ष्यते

सन्दर्भेंऽस्मिन् ह्यो नव दिल्ल्यां वार्ताहरान् विज्ञापयन् सूचना प्रसारण मन्त्री प्रकाश जावड़ेकर प्रावोचत् यदिदानीं गोध्मस्य न्यूनतम समर्थन मूल्यं प्रति क्विंटल पञचाशीति रूपयकै प्रवर्ध्य सपादोन विंशति शत रूप्यकात्मकं सम्पादितमस्ति

सन्दर्भेऽस्मिन् छो मन्त्रि परिषदो निर्णयं वार्ताहरेभ्यो विज्ञापयन् आवासप्रबन्धन नागरविषय मन्त्री हरदीप सिंह पूरी प्रवोचत् यदनया हर्षप्रद घोषणया दिल्ली स्थानाम् अष्टादश शत प्रायाणाम् अनधिकृत वसतीनां चत्वारिशल्लक्ष प्राया निवासिनो लाभान्विता भवितार